पञ्चविंशति आसनेष् घोषित परिणामेष् भाजपा दलेन दश कांग्रेस झारखण्ड म्क्तिमोर्चा दलयो षडासनानि विजितानि म्ख्यमन्त्रीय प्रत्याशिनां स्पर्धायां झारखण्ड म्क्तिमार्चाया हेमन्त शोरेन प्रोक्तं यत् विजयानन्तरं झारखण्डस्य राजनीत्यां एक नूतन अध्याय योजितो भविष्यति

झारखण्ड मतगणना झारखण्डे विधानसभाया सर्वेषाम् एकाशीति आसानाञ्कृते मतगणना प्रचलति संकेताधारे भाजपा दलं निर्वाचन क्षेत्रेष् दशासनान् प्रस्सरम् अग्रेसरति ततः कांग्रेस झारखण्ड मुक्ति मोर्चा राष्ट्रिय जनता दलानि षट् षट् आसनानि विजितानि सन्ति मुख्यमन्त्री रघ्बरदास नैर्यन्तर्येण जमशेदप्र आसनं विजयति मतगणनाया सर्वाधिक अष्टाविंशति आसनानि चतरायां सन्ति तत्र केन्द्रीय अर्द्धसैन्य बलानि नियोजितानि सन्ति झारखण्डे विधानसभाया पञ्चचरणेष् नवम्बर त्रिंशे दिसम्बर विंशे च मतदानं जातम झारखण्ड मुख्यमन्त्रीय प्रत्याशिनां स्पर्धायां झारखण्ड मुक्तिमार्चाया हेमन्त शोरेन प्रोक्तं यत् विजयानन्तरं झारखण्डस्य राजनीत्यां एक नूतन अध्याय योजितो भविष्यति रांची नगरे वार्ताहरैस्सह संभाषणे तेन प्रोक्तं यत् तदीय प्रशासनं जनानां स्वपनानि प्रप्रयिष्यति उत्तरप्रदर्शनम् प्रदेश उत्तरप्रदेश प्रशासनेन पुन प्रोक्तं यत् साम्प्रतिकेष् विरोध प्रदर्शनेष् विहित सार्वजनिक सम्पति क्षतिपूर्ति उपद्रविण एव प्रप्रायष्यिन्ते

तेनोक्तं यत् उच्चतम न्यायालयेन स्वीय आदेशे स्पष्ट कृतं यत् उपद्रविण एव क्षतिपूर्ते प्रतिपूर्ति करिष्यन्ते अत्रान्तरे प्रदेशस्य म्ख्यमन्त्रिणा योगी आदित्यनाथेन राज्यस्य विद्वांस अध्यर्थिता यत् ते विधि सन्धारणे प्रशासनस्य सहायतां क्य्

असौ अद्य नवदिल्ल्यां सूचना सम्पर्क प्रविधि पुरस्कार वितरण समारोहानन्तरम् अभिभाषते स्म

सत्याग्रहे कांग्रेसदलस्य राहलगान्धी प्रियंका गान्धी पूर्व प्रधानमन्त्री डॉ मनमोहन सिंहः ग्लामनबी आजाद मध्यप्रदेश म्ख्यमन्त्री कमलनाथ अहमद पटेलश्च समाविष्टा सन्ति